देशदेशान्तराणां वास्तव्यै सार्धं प्रधानमन्त्रिण मनोगत प्रकाशनस्य मन की बात कार्यक्रमोऽयं आकाशवाण्या दूरदर्शनस्य च सर्वाभि वाहिनीभि प्रसारयिष्यते

आकाशवाणी कार्यक्रमस्य अयं षष्टितमं संस्करणं विदयते

झारखंड झारखंड मुक्तिमोर्चादलस्य कांग्रेस राष्ट्रीय जनता दलयो च महासंयुत्या नेता हेमंतसोरेन अद्य झारखंडस्य एकादश म्ख्यमंत्री पदस्य शपथग्रहणं करिष्यति राज्यपाल द्रौपदी मुर्म श्रीसोरेनं गोपनीयताया शपथं विज्ञापयिष्यति शपथ ग्रहण समारोहस्य आयोजनं रांचीनगरस्य मोहराबादी प्रांगणे मध्याहने दविवादने भविष्यति नकवी केन्द्रीयमंत्री मुख्तार अब्बास नकवी न्यगादीत यत् ये जना नागरिकता संशोधन विधे अथ च राष्ट्रीय जनगणना पञ्जीकरणस्य विरोधं कुर्वन्ति ते असत्येन सह सत्यस्य आडम्बरं क्र्वन्ति म्म्बय्याम् एकस्मिन् वार्ताहर सम्मेलने तेन प्रोक्तम यत भारते मुस्लिमजना बलपर्वकं नैव तिष्ठन्ति अपित् देशस्य समर्पण भावेन निवसन्ति असमे आरक्षिण असमे आरक्षिभि जना अध्यर्थिता यत् ते सामाजिक सञ्चारमाध्यमेष् अपलापं मा प्रसारयेय न च तेष् विश्वासं कुर्वन्त्विति राज्यस्य अतिरिक्त आरक्षि महानिदेशक हरमीतसिंह आकाशवाण्या सह संवादे गतरात्रौ प्रावोचत् यत् सामाजिक सञ्चारमाध्यमानां प्रयोगावसरे विधे उल्लङ्घनं मा क्र्य निगदितं च यत् राज्य प्रशासनेन आरक्षिबलेन च सामाजिक सञ्चारमाध्यमानां प्रयोग सकारात्मकतायै विधात् ं जना समाकारिता

दवितीय रेलपथस्य शुभारम्भो जनवरी मासस्य सप्तदश दिनाड्के भविष्यति जनसामान्यस्य कृते इयं रेलसेवा जनवरी मासस्य नवदशदिनात् उपलप्स्यते

राष्ट्रपति रामनाथकोविन्द राजधान्यां नवदिल्ल्याम एकस्मिन समारोहे अमिताभाय उपायनमिदं प्रदास्यति

विश्व विजयिनी एमसीमैरीकॉम महिलानाम् एकपञ्चाशत् किलोग्राम भार वर्गे निकहत जरीनं पराजित्य आगामि वर्षस्य चीन ओलम्पिक क्वालीफायर इति प्रतियोगितायां योग्यतां प्रमाणितवती राष्ट्रीय म्ष्टा म्ष्टि योग्यता प्रमाणीकरणस्य अस्यां प्रतियोगितायां मैरीकॉम निकहतं नव एकम् इति अन्तरालेन पराजितवती